कोविडसन्देश प्रिय श्रोतार समस्तेऽपि देशे पुनः समेधमानेन विकराल कोरोना संक्रमणेन जनसामान्याः भयाकुलाः दरीदृश्यन्ते अतः भवन्तः प्रार्थ्यन्ते यत् सूच्यौषधम् अवश्यमेव स्वीकुर्वन्तु असावधानतां नैव आचरन्तु

मुखावरकं सन्धारयन्तु दैहिक दौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

सर्वकारेण प्राणवायोः उपलब्धतां वर्धयितुं उत्पादन क्षमतायां वृद्धिः ऑक्सीजन संयंत्राणि संस्थापयित्वा कृता वाणिज्य उद्योगमन्त्रालयेन निष्पादित यत् प्राणवयोः आपूर्ति शृंखलायां केन्द्रस्य दृष्टिरपि अस्ति

एवञ्च अयं सकारात्मक चिन्हः वर्तते यतो हि अनेन स्वस्थतामान नैरन्तर्यण वृद्धिम् प्राप्नोति अवधेयं वर्तते यत् कोरोना महामार्याः स्वस्थतामितिः अध्ना प्रवर्ध्य द्वयाशीति दशमलव त्रिअष्टमिता संवृता स्वास्थ्य मन्त्रालयेन प्रतिपादितं यत् विगते अहोरात्रे त्रि पंचाशदसहस्राधिकत्रिलक्षजनाः स्वस्थीभूताः

केंद्रप्रशासनेन ऑक्सीजन एक्सप्रेस इत्यनेन यानेन एकस्मिन् एव दिने विभिन्नेषु राज्येषु एक त्रिंशदधिकाष्टशतमीट्रिकटनमितं द्रव्य चिकित्सकीय प्राणवायुम् सम्प्रेष्य नवीनं कीर्तिमानं संस्थापितम्

इदं सत्रम् राष्ट्रपते विद्यादेवीभण्डारीवर्याया निर्देशे आसीत

मुख्यवार्ताकारस्य प्रवक्ता अस्याः घोषणायाः स्वागतं अभिव्यक्तम्